कृषिमन्त्री नरेन्द्रसिंहतोमर पुनरेकवारं सबलं अवादीत् यत् सर्वकार कृषकै सह वार्ता कर्तुं सर्वथा सज्जो वर्तते रक्षामंत्री राजनाथसिंह प्रावोचत् यत् भारतं विश्वं नवीनविचारै अप्रे नेत्म् चीनदेशात् उन्नतावस्थायाम् विद्यते वित्तमन्त्रालयेन सप्तमसाप्ताहिकराशित्वेन षड् सहस्र कोटि रूप्यकाणि राज्येभ्य जीएस्टी क्षतिपूर्ति पूर्वितुं प्रदत्तानि अपि च प्रधानमन्त्री नरेन्द्रमोदी बांग्लादेशस्य प्रधानमन्त्रि शेखहसीनया सार्धम् आगामि बृहस्पतिवासरे दृश्यश्रव्यप्रणाल्या सम्मेलनं विधास्यति

भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य संकल्पं स्वीकुर्वन्तु मुखावरंक सन्धारयन्तु सामाजिकदौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्तु

प्रधानमन्त्री अन्तरिक्षक्षेत्रस्य मुख्योद्योग सम्बद्धजनै सह भाषमाण आसीत् श्रीमोदी प्रत्यपादयत् यत् नूनं शीघ्रमेव भारतं व्योम विज्ञानसम्बद्धानां वस्तूनां निर्माणाय महत्वपूर्णं क्षेत्रं भविष्यति केन्द्रीय मन्त्रिमण्डलेन अस्मिन् वर्षे जूनमासे निजी क्षेत्राणां सहभागितायै अन्तरिक्षक्षेत्रं उद्घाटितम्

प्रधानमन्त्री नैकेषां विकासकार्यक्रमाणां परियोजनानां च आधारशिलां संस्थापयिष्यति एतासु परियोजनासु नवीकरणीयोजा उद्यानं स्वचालित दृग्ध संयत्रंप्रभुतय परियोजनाः सन्ति

तोमर कषकाश्च कृषिमन्त्री नरेन्द्रसिंहतोमर पुनरेकवारं सबलं सर्वकारस्य कृषकै सह वार्ताया पक्ष संस्थापित वार्ताहै सह भाषमाण श्रीतोमर अवादीत् यत् सर्वकार कृषकै सह वार्ता कर्तू सर्वथा सज्जो वर्तते

राजनाथ फिक्की रक्षामंत्री राजनाथसिंह प्रावोचत् यत् भारतं चीनदेशात् विश्वं नवीनविचारै अग्रे नेतृम् उन्नतावस्थायाम विद्यते श्री राजनाथसिंह कोविड नवदशप्रसंगे उक्तवान् यत् सर्वकारेण महामारीत प्रभाविरीत्या निरोधार्थं भविष्यत्कालिका पदक्षेपा विहिता सन्ति

जीएसटी वित्तमन्त्रालयेन सप्तमसाप्ताहिकराशित्वेन षड़ सहम्र कोटि रूप्यकाणि राज्येभ्य जीएसटी क्षतिपूर्ति पूरयित्वं प्रदत्तानि अस्मात् राशे सार्धपञ्च सहस्रकोटिरूप्यकाणि त्रयोविंशतिभ्य राज्येभ्य तथा च पञ्चशतं कोटि रूप्यकाणि त्रिभ्य केन्द्रशासित प्रदेशेभ्य प्रदत्तानि प्रधानमन्त्री शखि हसीना प्रधानमन्त्री नोन्द्रमोदी बांग्लादेशस्य प्रधानमन्त्रि शेखहसीनया साधं अस्य मासस्य सप्तदशे दिनांके दृश्यश्रव्यप्रणाल्या सम्मेलनं विधास्यति उभौ नेतारौ उभयो देशयोर्मध्ये सम्बद्धान सहयोगं च दृढीकर्तू विस्तृतचर्चा सम्पादयिष्यत